प्रधानमन्त्रिणा श्रीनरद्विमेदिना भणितं यत् मुख्यमन्त्रिणो मनोहालाल खट्टास्य नकूंब्विद्विरियाणा प्रशासन्दी राज्य भ्रेरि विकास कार्याणि कृतानि सन्ति नियुक्तिष्वपि भ्रष्टाचार समापित प्रधानमन्त्री अद्य हरियाणाया सिरसा जनपदप्रिलनाबादप्रिकां नैर्वाचनिकीं जनसभां सम्बोधयति स्म श्रीमोदिना प्रद्वित यत् करतारप्र वीथिका विनिर्मितास्ति

उत्तरप्रदेश हत्या उत्तरप्रदर्तआरक्षि बलर्मग्जरात एटीएस द्वारा जनत्रयस्य निगडनाननतरं हिन्दू समाज पार्टीति दलस्य अध्यक्षस्य कमलधितिवारी वर्यस्य हत्या प्रकरणस्य समाधान सबल व्याहतम